भारतं समागतेन अमेरिका राष्ट्रपतिना साबरमती आश्रमं सम्प्राप्य राष्ट्रपित्रे महात्मगान्धिने श्रद्धासुमनांसि समर्पितानि कृषि मन्त्री नरेन्द्र सिंह तोमर अद्य प्रधानमन्त्रि किसान मोबाइल ऐप्लिकेशन इत्याख्यं कृषकेभ्य भ्योऽपि सौविध्यप्रदं अन्तर्जाल सौविध्यं समारब्धवान् उच्चतम न्यायालय मण्डलेनाद्य जम्मूकश्मीर उच्चन्यायालयस्य न्यायाधीशत्वेन न्यायतन्त्राधिकारित्रयं नियुक्तम

सर्वतोप्रथमं अमेरिका राष्ट्रपते भारतागमने अहमदाबादस्थं विमानपत्तनस्थलं स्वात्मना उपेत्य प्रधानमन्त्रिणा ट्रम्पस्य सैन्य सम्मान पृर्वकं स्वागतं समाचरितम् ततो नेतुद्वयं साबरमती आश्रमं सम्प्राप्य राष्ट्रपित्रे महात्मगान्धिने श्रद्धासमनांसि समर्प्य जगत विशालतमं मोटेरा क्रीडांगणं सम्प्राप्तवत श्रीट्रम्प पत्नी पृत्या च सहक्रतो वर्तते मोटेरास्थले निर्मिते सरदार पटेल क्रिकेट क्रीडांगणे आयोजिते भव्ये नमस्ते ट्रम्पाख्ये कार्यक्रमे अद्य नेतुद्वयाभ्यां जनसागर सम्बोधित एकलक्षाधिके जनभरितेऽस्मिन् क्रीडांगणे अभिभाषणावसरे उभौ नेतारौ भारतामेरिकादेशयोर्मध्ये अतोऽपि सुदुढ सम्बंध स्थापनाथं वचनबद्धतां प्रकाशितवन्तौ

प्रधानमन्त्री अद्य प्रधानमन्त्री कृषक सम्मान निधि योजना प्रवर्तनस्य वर्षपूर्ति दिनांको विद्यते चतुर्विंशे दिनांके उत्तस्प्रदेशस्य गोरखपूर प्रधानन्त्रिणा नरेन्द्रमोदिना समारब्धासीत् योजनैषा योजनान्ग्णं प्रत्येकस्मिन् वर्षे कृषकाणां बैंकेष् षट् सहस्वं रुप्यकाणि स्थानान्तरति प्रशासनम् योजनया साम्प्रतं यावत् प्राय सार्ध अष्ट कोटि कृषका लाभान्विता सन्ति दिनमिदमालक्ष्य कृषि मन्त्री नरेन्द्र सिंह तोमर अद्य प्रधानमन्त्रि किसान मोबाइल ऐप्लिकेशन इत्याख्यं कृषकेभ्य भ्योऽपि सौविध्यप्रदं अन्तर्जाल सौविध्यं समारब्धवान् योजनाया इतोप्यधिकं विस्तारं कृषकाणां लाभं चावधार्य सेवेऽयं समारब्धा कृषिमन्त्रिणा

वार्ताकारै प्रदर्शनकारिभि साधं विहितेन विचार विनिमयस्याधारेण स्वीयं प्रतिवेदनमिदं शीर्षन्यायालयं प्रति प्रस्तुतमस्ति